उत्तर पूर्वीय परिषद एकोनसप्ततितमं परिपूर्ण सम्मेलनं गृहमन्त्रिणा अमितशाहेन शिलांगे समुद्घाटितम् अध्नावधिनवतिसहस्राधिक त्रयोदशलक्षाधिका जना कोविड् नवदशसूच्यौषध लाभम् प्राप्तवन्त

यावन्नौषधम् तावन्न शैथिल्यम्

प्रधानमन्त्री कोलकाता प्राप्त्यनन्तरं महते स्वतन्त्रता सेनानिने श्रद्धाव्जलिम् अर्पयित् दक्षिणकोलकातायां नेताजीभवनं यात

एतत्पूर्व प्रधानमन्त्री असमस्य जेरेङ्गापाथरे षट्सहस्रोतैरेकलक्ष भूमि पट्टानां प्रमाणपत्राणां च वितरणं व्यदधात् तेनोक्तं यत् असम आत्मनिर्भर भारतस्य एक महत्वपूर्ण भाग विद्यते तथा च अत्र एकादशसहस्र परिमितानां राजमार्गाणां निर्माणो विहितोस्ति श्रीमान् मोदी प्रोक्तवान् यत् आत्मनिर्भरो असम राज्यस्य जनानां आत्मविश्वासस्य प्रतीक अस्ति असमस्य चत्वारिशत् प्रतिशतं जनङ्संख्या केन्द्रसर्वकारस्य आयष्मान भारत इत्योजनया लाभान्विता जायते गृहमन्त्री केन्द्रीय गृहमन्त्रिणा अमितशाहेन अद्य शिलांगप्रान्ते पूर्वोत्तरीय परिषद एकोनसप्ततितमस्य उपवेशनस्य अध्यक्षता कृता

उपवेशनमिदं श्व समाप्स्यते सहैव अस्मिन् विभिन्नानां विकासपरियोजनानां समीक्षापि भविता नेताजी जन्म राष्ट्रम् अद्य महते स्वतन्त्रतासेनानिने स्भाषचन्द्रबोसाय तस्य जन्मजयन्त्यवसरे श्रद्धाव्जलिं समर्पयति सप्तनवत्युत्तर अष्टादशशततमे ख्रीष्टाब्दे ओडिसाया कटके सुभाषचन्द्रस्य जन्म अभवता अयं दिवस पराक्रमदिवसत्वेन परिपाल्यते वर्षपर्यन्तं प्रचल्यमानस्य उत्सवस्य श्भारम्भ अपि अद्य जात प्रशासनेन निर्णीतम् अस्ति यत् जनवरीमासस्य त्रयोविंश दिवस प्रतिवर्ष पराक्रमदिवस त्वेन परिपाल्यते

राष्ट्रपति नेताजी राष्ट्रपतिना श्रीरामनाथकोविन्देन नेताजी सुभाषचन्द्रबोसवर्यस्य जन्मजयन्त्यवसरे अद्य राष्ट्रपतिभवने तस्य चित्रस्य अनावरणं विहितम् सममेव वर्षपर्यन्तं विधीयमानानां कार्यक्रमाणां अपि प्रारम्भो विहित

एकस्मिन ट्वीटालेख्ये असौ न्यगादीत् यत् वैश्विक महामारीं पराजितुं भारतस्य सहयोग प्रशंसनीय तत्रैव प्रधानमन्त्रिणा नरेन्द्रमोदिनापि प्रोक्तं यत् महामारीं विरुध्य युद्धे ब्राजीलदेशस्य विश्वसनीययोगदानं विद्यते यद्धि महतो हर्षस्य विषयो वर्तते इति तेन इदमपि प्रोक्तं यत् उभयो देशयोर्मध्ये स्वास्थ्यसेवाक्षेत्रे सहयोग अग्रेऽपि प्रचलयिष्यति इति हलुवा समारोह आगामि वित्तीयवर्षस्य केन्द्रीय व्यय पत्रकनिर्माणस्य अन्तर्गतं संयावविधि अद्य उदीच्य खण्डे समाचारित वित्त मन्त्रालयेन प्रोक्तं यत् अयं संयावविधि प्रतिवर्ष ं व्ययपत्रक निर्माण प्रक्रियाया प्रारम्भाद् पूर्वं परिपाल्यते

वित्तमन्त्रालयानुसारि आयव्ययपत्रकं प्रथमवारं पत्रविहीन रीत्या प्रस्तोष्यते